कोविड नाइन्टीन् इति वैश्विक संक्रमणं विरुध्य भारतीय संघर्ष प्रवर्धतेतराम् भारते प्रत्यवाप्तिमिति नव त्रीणि दशमलवोत्तर चतुर्नवति प्रतिशतं यावत् विवर्धिता

कोविड आपनिंग प्रिया श्रोतार कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य राष्ट्रं ऐक्यभावनया युध्यते

मुखनासिकाच्छादकं सामाजिकदौर्यानुपालनं पाणिपादप्रक्षालनञ्च इति उपायत्रयं सर्वदैव अवधारयन्तु यतोहि कोरोना प्रतिरोधी नियमपालनमेव क्शाग्रब्द्धि परिचायकम्

अस्मिन्नवसरे राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्द्रिणा च भीरुतापूर्ण आक्रमणम् इदम् विफलीक्वद्भ्यो भारतमातुः हृतिंगतेभ्यो वीरभटेभ्य स्वीय श्रद्वास्मनांसि समर्पितानि राष्ट्रपतिना श्रीरामनाथकोविन्देन प्रोक्तं यत् अखिलमपि भारतं संसदभवन रक्षायै स्वीयप्राणान् समर्पितवद्भ्यो स्मरणपूर्वकं स्वीयभावाञ्जलि समर्पयति उपराष्ट्रपतिना एम् वैंकेय्या नायड्ना प्रत्यपादि यत् दिनमिदं अस्मान् स्मारयति यत् आतंकवादं लोकतन्त्राय हानिकरं विद्यते विश्व सम्दायेन ऐक्यभावनाप्रस्सरं आतंकवाद पोषक राष्ट्राणां विरुध्य पदक्षेप सम्त्थापनीय अत्रान्तरे प्रधानमन्त्री श्रीनरेन्द्रमोदी सम्दीरयत् यत् भारतं अस्यशताब्दस्य प्रथमे वर्षे दुरापादितं आतंकवादिनां क्कृत्यमिदं कदापि नैव विस्मर्तु शक्यते राष्ट्ररक्षायै सर्वोच्चबलिदानसमर्पणकर्तार अस्माभि सर्वदैव संस्मरिष्यन्ते इति लोक सभाध्यक्ष ओमविरला अपि एतद् वीरेभ्य सद्भावनाप्रस्सरं श्रद्वाञ्जलिं समार्पयत्

कृषि मन्त्री हरियाणा प्रदेशीयेन कृषक प्रतिनिधि मण्डलेन अभिनव कृष्यधिनियम विषयं आलक्ष्य केन्द्रीय कृषि मन्त्रिणा नरेन्द्र सिंह तोमरेण साकं सम्मिल्ल्य स्वीयं समर्थनं सम्द्घोषितम् अस्य कृषक प्रतिनिधि मण्डलस्य प्रतिनिधित्वं भारतीय कृषक संघस्य ग्नी प्रकाश इत्यनेन विहितम् श्रीप्रकाश हय नवदिल्ल्यां कृषिमन्त्रिणे नरेन्द्रसिंह तोमराय समर्थनपत्रं समार्पयत् अपि च न्तनकृषिविधिं यथावत् प्रवर्तनाय अयाचत् एतत्कृषकै स्पष्टीकृतं यत् एत्कृषिविधिनां निरस्ते कृते सति तै विरोध प्रदर्शनं विधास्यते इत प्रागपि हरियाणा राज्यस्य एकेन कृषक संघेन कृषिमन्त्रिणा सह समिल्ल्य एतद्विधय समर्थिता आसन् एतदनन्तरं वार्ताहर सम्मेलने कृषि मन्त्री समसूचयत् यत् कृषक नेतृभि मेलनं विधाय अभिनव कृषिविधय समर्थिता सन्ति इति अपि तै एतत् विधिकारणेन समवाप्तलाभा अपि परिगणिता तेन पुनरेकवारं कृषकां समाश्वासिता यत् एते विधय कृषकाणां हिताय वर्तन्ते

भारते अनारतं प्रत्यवाप्तिमितौं परिष्कारो जाजायते भारते कोरोना संक्रमण प्रतिरोधी वीराणां प्रयासेन प्रत्यवाप्तिमिति नव त्रीणि दशमलवोत्तर चत्नर्नवति प्रतिशतं यावत् विवर्धिता स्वास्थ्यमन्त्रालयेणोक्तं यत् विगते अहोरात्रे त्रयस्त्रिंशत् सहस्राधिक जना स्वस्थीभूता सममेव आहत्य सप्तपञ्चाशत् सहस्रोत्तर त्रिनवति लक्षाधिका जना स्वस्थीभूता चत्पञ्चाशदधिक द्वि शताधिक त्रिंशत् सहस्रं नूतनप्रकरणानि पञ्जीकृतानि आहत्य देशे नवविंशत्यधिक सप्तपञ्चाशत् सहस्राधिक अष्टनवति लक्षं जना अस्मात् महामार्या संक्रांता सूच्यन्ते गत चत्र्विशति होरास् एकनवत्याधिक त्रिशतं जना कालकवलीभूता आहत्य देशे नवविंशत्यधिक त्रिचत्वारिंशत् सहस्राधिक एकलक्ष्मं जना कालकवलिता इति यूएस वैक्सीन संय्क्तराज्यामेरिकायां श्व आरभ्य वृहन्मात्रायां कोविड नाइन्टीन इति वैश्विक संक्रमण प्रतिरोधी सूच्यौषधस्य प्रयोगाभियानम् आरप्स्यते अमेरिकीयै अधिकारिभि संसूचितम् यत् कोविड नाइन्टीन् प्रतिरोधी सूच्यौषधस्य सज्जता प्रारुप अन्तिमे चरणे वर्तते श्व आरभ्य सूच्यौषध प्रयोगाभियानं विधास्यते येन हि कोविड कारणेन मृत्युप्रकरणं समाप्तिं ऐष्यति अवधेयास्पदं वर्तते यत् संयक्त राज्यामेरिकायां अनेन संक्रमणेन त्रिलक्षाधिका जना कालकवलिता सूच्यन्ते इति

अस्मिन् षष्ठमे चक्रे एकत्रिंशत् आसनेष् मतदानम् अनुष्ठितम् अस्ति

येष् शतं महिला प्रत्याशिन्यो वर्तन्ते

अस्मिन् प्रकरणे प्रतिशतं सप्त नव दशमलवोत्तर द्वि चत्वारिंशत् मितं निर्वाचनम् अंकितम् अस्मिन् चरणे प्राय सार्धसप्तलक्ष मतदातार मतदानाय शक्ता अवर्तन्त इदं निर्वाचनं अष्टचरणेष् सम्पत्स्यते परिणामश्च अस्य मासस्य द्वाविंशे दिनांके उद्घोषयिष्यते इति निर्मला सीतारमण वित्तमन्त्री निर्मला सीतारमण श्व नवदिल्ल्यां विभिन्नै हितधारक समूहै साकं प्राक् आय व्यय पत्रक विषयकं परामर्शोपवेशनं समन्ष्ठास्यते इति एतानि उपवेशनानि आगामि वित्तवर्षाय समायोक्ष्यन्ते वित्तमन्त्रालयेन स्पष्टीकृतं यत् वित्तमन्त्री सीतारमण उद्योगपतिभि साकं अपि परामर्शपरं उपवेशनं अनुष्ठास्यते इति जावेडकर बीजेपी इलेक्शन वरिष्ठो भाजपा नेता केन्द्रीय सूचना प्रसारण मन्द्री च प्रकाश जावडेकर प्रत्यपादयत् यत् अचिरमेव विभिन्नेष् राज्येष् समधिगता निर्वाचन परिणामा संसूचयन्ति यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे अपि तस्य जनकल्याणनीतिष् जनसामान्यं विश्वसिति इति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 तेन प्रोक्तं यत् दलेन वोडोलैण्ड क्षेत्रीय निर्वाचनाय म्ख्य कार्यकारी सदस्यत्वेन उद्घोषित तेन स्पष्टीकृतं यत् विहार विधान सभा निर्वाचन परिणाम भवत् उताहो विभिन्न राज्याणां उपनिर्वाचन परिणाम वृहद हैदराबाद नगर निकाय निर्वाचन परिणाम भारतीय जनता पार्टी इति दलेन जनसामान्यस्य समर्थनं सर्वदैव अवाप्तवत् अस्ति तेन कांग्रेस दल प्रति टीकास्त्रं विदधता स्पष्टीकृतं यत् कांग्रेस दलं राजनीतिकरणे पराजयमुखं प्राप्तवत् अस्ति